भारतामेरिका देशौ विविधान क्षेत्रीयान वैश्विकांश्व विषयान अधिकत्य वॉशिंग्टने द्वि पाक्षिक सम्भाषणमाचरत राष्ट्रपति रामनाथ कोविन्द महात्मा गान्धिन साधैंक शत तमीं जयन्तीम् उपलक्ष्य आयोजयिष्यमाणानां समारोहाणां कृते संघटिताया समिते द्वितीयोपवेशनस्य आध्यक्ष्यम् अद्य नवदिल्ल्यां विधास्यति भारत वेस्टइंडीजयोर्मध्ये अनुवर्तमानाया स्पर्धा त्रयात्मिकाया अन्ताराष्ट्रियैक दिवसीय क्रिकेट स्पर्धा मालिकाया द्वितीयं द्वन्द्व भारतेन विजितम् गतरात्रौ आयोजिते द्वितीयेऽस्मिन् द्वन्द्वे भारतेन वेस्टइंडीज दलं सप्ताधिकैक शत धावनाड्कै पराजितम्

परञ्च अस्य विधे प्रवर्तनं प्रत्याख्यातमस्ति मुख्यन्यायाधीश युतेन खण्डपीठेन प्रकरणे पुन वादश्रवणाय आगामिनो जनवरी मासस्य द्वाविंशति दिनांक सुनिश्चितोऽस्ति ध्येयमस्ति यत् नागरिकता संशोधन विधे विरोधे इण्डियन यूनियन मुस्लिम लीग इत्यनेन कांग्रेसनेत्रा जयराम रमेशेत्यमुना अन्यैश्च जनै याचिका पब्जीकृतास्सन्ति

उपवेशनेऽस्मिन् विदेशमन्त्री एस् जयशंकर प्रतिरक्षा मन्त्री राजनाथ सिंहध भारतस्य अमेरिकीयो विदेशमन्त्री माइक पोम्पियो अमेरिकीयो रक्षामन्त्री मार्क इस्परश्व अमेरिकाया प्रातिनिध्यम् आवहन्ति राष्ट्रपति राष्ट्रपति रामनाथ कोविन्द महात्मा गान्धिन साधैंक शत तर्मी जयन्तीम् उपलक्ष्य आयोजयिष्यमाणानां समारोहाणां कृते संघटिताया समिते द्वितीयोपवेशनस्य आध्यक्ष्यम् अद्य नवदिल्ल्यां विधास्यति

श्री कोस्टा भारतस्य आधिकारिक यात्रा प्रसंगे अद्य नवदिल्लीं सम्प्राप्नोति प्रशासन् महात्म गान्धिन सन्देशान् प्रसारयित् राष्ट्रिय स्तरे अन्ताराष्ट्रिय स्तरे च समारोहायोजनादि सदृशान् प्रयासान् विदधाति एतदर्थम् संघटिताया आयोजन समिते अध्यक्षता राष्ट्रपतिना रामनाथ कोविन्देन विधीयते

श्रीलंका भारतयो नौसैन्य सम्बन्धान् सुदृढीकतुं यात्रेयं विधीयते